कोविड अद्यतनम् भारत क्रोविड सूच्यौषध प्रदानोपक्रम इल्लखिमीय उत्साह दरीदृयश्यत अस्मिन् प्रधानमन्त्रिण टीका उत्सव इत्याख्यस्य एकादशत चतुर्दशतालिकापर्यन्तस्य अभियानस्य योगदानम् उल्लख्मीयमस्ति

निर्णयोऽयं द्विहोरात अल्पकालीय यात्रायां प्रभावित भविष्यति वैमानिकसद्विप्रदातार पूर्वादक्ष्ञसन्नद्विकृतभोजनस्य वितरणं कर्त् शक्नुवन्ति